केन्द्रीयो गृहमन्त्री अमितशाह सप्तत्युत्तर त्रिशत तम संख्याकस्य अन्च्छेदस्य निरसनं मोदीप्रशासनस्य आतंकवादं विरूद्धय निर्णायक पदक्षेपत्वेनोपवर्णित हरियाणा महाराष्ट्र विधानसभेय निर्वाचनेभ्य विभिन्न दलानां वरिष्ठ नेतृणां प्रचाराभियानानि तीव्रीभूतानि केन्द्रीय संचारमन्त्री रविशंकरप्रसाद ब्रूते यत् पंचविंशतिको लेखा धारकाणा स्वीय ं लक्ष्य प्रप्रयित् प्रैष्यविभाग प्रयत्न कुर्यात् रक्षामन्त्री रक्षामन्त्री श्रीराजनाथसिंह निगदति यत् अनुसन्धान प्रक्षेपास्त्रयो उत्कर्षे डॉ एपीजे अब्द्ल कलामस्य योगदानम् इतिहासभूतम् अयं हि तथाभूत अन्सन्धान प्रक्षेपास्त्रविकासपर महत्त्वाधायि कार्यक्रम वर्तते येन भारतदेश स्वदेश निर्मित प्रविधि क्षमता युतानां देशानां सूच्याम् उपस्थापितोऽस्ति अद्य नवदिल्ल्यां डीआरडीओ इति रक्षानुसन्धान विकास संघ िस्य निदेशक सम्मेलनं सम्बोधयन् रक्षामन्त्री प्रावोचद् यत् सत्यां प्रतिकृलस्थितौ संघ िनैतेन सैन्यशक्ति प्रबलयित्म् आवश्यक प्रणालि उत्पाद प्रविधिविकास यूता कार्यक्रमा प्रकल्पिता

तवैव सेनाप्रमुख जनरल बिपिनरावत आर्थिफ़िशियल इन्टिलिजेन्स इति कृत्रिम बुद्धिमत्ता विषयमवलम्ब्य कार्याचरणस्यावश्यकतां सबलम् न्यगदत् विश्वस्य उच्चस्तरं प्राप्तानि संस्थानान्यनगणम अभिनव प्रविधि विकासाय अचकथत् नौसेनाप्रमुख एडमिरल करमबीरसिंह दिवसेऽस्मिन् रक्षामन्त्रिणा वैज्ञानिक क्षेत्रेष् अनुभूत समस्यानां समाधानं कृतेभ्य प्रतिभासमन्वितेभ्य युवभ्य कलाम डेयर ट्र ड्रीम इत्याख्य पुरस्कार प्रदत्त ग़हमन्त्री केन्द्रीयो गृहमन्त्री अमितशाह सप्तत्युत्तर त्रिशत तम संख्याकस्य अनुच्छेदस्य निरसनं मोदीप्रशासनस्य आतंकवादं विरूद्धय निर्णायक पदक्षेपत्वेनोपवर्णितः अम्नोदीरितं यत् पाकिस्तानात् आतंकवादं विगतवर्षेभ्य प्रवर्तितेभ्य षड्यन्त्रपरं युद्ध च विरूद्धय प्रशासनस्य एषैतिहासिको निर्णय सः हरियाणाया मानसरोवरे एन एस जी इति राष्ट्रिय सरक्षा रक्षकस्य पंचत्रिशत्तमे स्थापनादिवस कार्यक्रमे सम्बोधयति स्म

राष्ट्रिय स्रक्षा रक्षकाणां योगदानं प्रशंसन् गृहमन्त्री अचकथत् यत् आतंकवाद प्रतिकर्त् विनष्ट्व रक्षका इमे सर्वतोभावेन समर्था इति निर्वाचनम् हरियाणा महाराष्ट्र विधानसभेय निर्वाचनेभ्य विभिन्न दलानां वरिष्ठ नेतृणां प्रचाराभियानानि तीव्रीभूतानि अद्य महाराष्ट्रे चरखी दादरी स्थले नैर्वाचनिकीं जनसभा सम्बोधयन् प्रधानमन्त्री श्री नेन्द्रमोदी प्रोक्तवान् यत् राष्ट्रहितं निध्याय प्रशासनेन नैके पदक्रमा समपकल्पिता भाजपादलेनाद्य मम्बय्यां स्वीयं नैर्वाचनिकं घोषणापत्रं संकल्पपत्रं इति प्रख्यापितम

ध्येयमस्ति यत् राज्यद्वयमपि अस्य मासस्य एकविंशे दिनांके मतदानानि सम्मुखीकरिष्यति

नवदिल्ल्याम् अद्य राष्ट्रिय प्रैष्य सप्ताह समारोहावसरे असौ एतत् सर्वं प्रत्यपादयत् जम्मू कश्मीरम् जम्मूकश्मीरे पूंछजनपदे अद्य पुरनेकदा पाकिस्तानेन आरक्षिस्थात्राणि नागरिकक्षेत्राणि चाभिलक्ष्य गोलिकाप्रहारा प्रारब्धा